सर्वोच्च न्यायालया स्वकीय महासचिवाद् विवरणम् अभियाचितं यत् उन्नाव दृष्कर्म पीडितया प्रधान न्यायाधीशाय रंजन गोगोई वर्याय लिखितं पत्रं तस्य सम्मुखं किमर्थं नैव प्रस्तुतमिति

पीठ ्य प्रत्र पत्रिकासु प्रकाशित वार्तासु अपि दुःखं प्रकाशितं यासु प्रधान न्यायाधीशस्य मृषा कार्यान्वयन शैथिल्यं प्रतिपादितमस्ति

विधस्किस्य अभ्य्पगमनाय अष्टोत्तरैक शत राज्यसभा सदस्यानां समर्थनं प्राप्तम् अस्य विरोध च त्रयोदश सदस्यै विहित